निर्माणे महतीं भूमिकां निर्वक्ष्यभारतस्य एतादृशानां योजनानां निर्माणं जनानां श्रमार्जितकरेण क्रियते अतन करणीया प्रदर्शनादिष् एतेषां हानि केन्द्रसर्वकारेण कृषि सम्बद्धानां विधित्रयाणां कार्यान्वयनमधिकृत्य जायमानं गतिरोधम् अपाकर्त्म् श्ववार्तायै प्रदर्शनकारीणां कृतम्

देशे कोविडस्व एकोनविंशति महामारीत स्थीभूतानां जनानां प्रतिशतता सम्प्रति संवर्ध्य पंचनवति दशमलव नव द्वि प्रतिशतं भवन् अस्ति अद्य क्रिकेटस्पर्धायां मेलबोर्नप्रान्ते जातायां द्वितीयश्रृंखलायां भारतेन ऑस्ट्रेलियादेशस्योपरि ऐतिहासिकं विजयं प्राप्तम् कोविड ओपनिंग कोरोणामहामारी विरुध्य राष्ट्रम् ऐक्यभावनया युद्ध्यते भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु वार्ताः विशदीकृत्या ई डी एफ सी मोदी प्रधानमन्त्रिणा नरेन्द्रमोदिना उत्तरप्रदेशे ईस्टर्न डेडिकेटेड फ्रेट कॉरिडोर इत्याख्यस्य प्रखण्डैकम् राष्ट्राय अर्पितम् उक्तं च वीथ्यैषा आत्मनिर्भर भारतस्य निर्माणे महतीं भूमिकां निर्वक्ष्यति प्रधानमन्त्रिणा अद्य आभासीय कार्यक्रमे ईडीएफसी इत्यस्य नवभाउपर नवखर्जा प्रखण्डस्य उद्घाटनं कृतम महत्वाकांक्षेषा प्रखण्डवीथि राष्ट्राय समर्पयन् श्रीमोदिना प्रोक्तं यत् वीथ्यैषा आत्मनिर्भरभारतस्य निर्माणे किसान रेलेभ्यश्च सहयोगाय महतीं भूमिकां निर्वक्ष्यति प्रधानमन्त्रिणा अद्य दृश्यश्रव्यप्रणाल्या देशस्य भाउपुर खुर्जा क्षेत्रयो सम्पर्काय समर्पितां ईडीएफसी इत्याख्यां सेवां समुद्घाटितम् एकपंचाशदृत्तर त्रिशतकिलोमीटरात्मकं प्रखण्डोऽयं उत्तरप्रदेशे अस्ति सार्धपंचकोटितोऽपि अधिकमूल्यै निर्मितेयं सेवा कानप्र फिरोजाबाद इटावा अलीगढादिभ्य मण्डलेभ्य व्यवसाय संवर्धनाय महत्वाधायिनी अस्ति अवसरेऽस्मिन् श्रीमोदिना भणितं यत् राष्ट्रस्य कृते विकासाय सम्पर्कस्विधाया भूमिका तथैव महत्वपूर्णा यथा स्वस्थशरीराय मेरूदण्डस्य धमनीयानां च भवति तेन अप्रे उक्त यत् आधारभूतसंरचनाया विकासस्य सम्बन्ध सम्पर्कश्च नास्ति राजनीत्या सह

एतादृशानां योजनानां निर्माणं जनानां श्रमार्जितकरेण क्रियते अतः प्रदर्शनादिषु एतेषां हानि न करणीया केन्द्रियसर्वकारस्य विभिन्नान् परियोजनान् संस्मारयन् श्रीमोदिना निगदितं यत् रेलीय आधारभूतसंरचनाया अभिवर्धनात्मिकी भावना प्राक्तनीयानां सर्वकाराणां नासीत् ते त् केवलं निर्वाचनेष्वेव लाभाय जनवाहिन्या रेलसुविधाया संख्याभिवर्धनाय तत्परा आसन्

वार्तेयं षष्ठीतमा भविष्यति केन्द्रेण चत्वारिशतु कृषिसंघठनान् वार्तायै आमन्त्रितम्

उपवेशनस्यास्य महत्वं तदा अपि च वरिवर्धते यदा द्यस्तनीयं प्रधानमन्त्रिण वक्तव्यं प्रकाशे आयाति

भवन्त भवत्यश्च संस्कृतवार्ताया संस्करणमिदं इदानीम् आकाशवाणीत श्रण्वन्ति

सूच्यौषधे प्रथमचरणे आन्ध्र प्रदेश ग्जरात पंजाब असम राज्येष् दिनद्वयस्य सफलतया अभ्यास अभवत् अस्य अभ्यासस्य उद्देश्यं सम्भावित संकटान् ज्ञात्वा योजनायां अपेक्षितं परिष्कारं च कृत्वा सूच्यौषधि प्रदानप्रक्रियां पूर्णरूपेण निर्बाधगत्या अग्रे नयनं वर्तते स्वास्थ्यमन्त्रालयेन प्रोक्तं यत् द्विनद्वयस्य अभ्यासेन विभिन्नस्तरेष् कार्यक्रमप्रबन्धकेभ्य आवश्यक अन्भव भविष्यति इति

स्वास्थ्यमन्त्रालयेन स्पष्टीकृत यत् सूच्यौषधिप्रदान अनन्तर सम्भावितानां दुष्प्रभावानां प्रबन्धने वैशिष्टयेन ध्यातव्यम एवं च प्राप्त सूचना विचाराश्च केन्द्रसर्वकार राज्येभ्य स्वास्थ्यविभागेभ्यश्च प्रदास्यति इति इयं आवश्यकी सूचना नवदिल्लीस्थ वर्धमान महावीर चिकित्सा महाविद्यालयस्य अपि च सफदरजंग चिकित्सालयस्य चिकित्सकेन डॉ नीरज गुप्ता इत्याख्येन ह्यस्तनमेव प्रदत्ता कोविड अपडेट देशे कोविड एकोनविंशति महामारीत स्वस्थीभूतानां जनानां प्रतिशतता सम्प्रति संवर्ध्य पंचनवति दशमलव नव द्वि प्रतिशतं भवन् अस्ति गत चत्र्विंशति होरास् संक्रमितानां संख्या द्वित्रिंशदधिक चत्शतमृत्तर षोडश सहस्रम् अस्ति स्वास्थ्यमन्त्रालयेन प्रोक्तं यत् विगतरात्री यावत् द्विपंचाशदधिकद्विशतम् जना मृत्युम् उपगता अथ च नवशताधिक चतुर्विंशतिसहस्रं जना स्वस्थीभूय गृहं प्रत्यागता सन्ति ओडिशा ओडिशा प्रान्तस्य सर्वकारीयविद्यालयेष् अध्ययनरतान् छात्रान् उच्चशिक्षायै चिकित्सायां प्रौद्योगिकी महाविद्यालयेष् प्रवेशाय आरक्षणस्य लाभ प्रदास्यते ह्य राज्यमन्त्रिमण्डलस्य उपवेशने अयं निर्णय निर्णीत निर्णयानन्तरं ओडिशा उच्च न्यायालयस्य सेवानिवृत्त न्यायधीशानां आध्यक्षे समित्या उपवेशनं भविष्यति यस्मिन् एषा समिति नृतनाया नीत्या आधारशिलां स्थापयिष्यति छात्रवृत्ति थावरचन्द्र सामाजिक न्यायाधिकारिता च मन्त्रिणा थावरचन्द गहलोतवर्येण निगदितं यत् सर्वकार अनुसूचित जातिवर्गीयाणां छात्राणां कल्याणाय प्रतिबद्ध अस्ति सर्वकारेण वर्गस्यास्य उच्चशिक्षामवाप्त्कामानां छात्राणां छात्रवृत्रौ ऐतिहासिकं परिवर्तनम् प्रतिपादितमस्ति अद्य नवदेहल्यां वार्ताहैर सह संभाषयन् श्रीगहलोतेन कथितं यत् दशम्या कक्षाया अनन्तरं शिक्षां प्राप्तकामानां अनुसूचित जातीयछात्राणा कृते अष्टचत्वारिशदधिक एकोन षष्टिकोटीरूप्यकाणां राशि छात्रवृत्यै सर्वकोरण स्वीकृता अस्ति केन्द्रियसर्वकार समग्रराशे षष्टि प्रतिशतांशं स्वयमेव संवक्ष्यति मन्त्रिणा अप्रे उक्तं यत् अनुसूचितजाते छात्रा प्रायश षड्रिंशदधिक एककोटी संख्यका दशम्यानन्तरं शिक्षामवाप्तुम् असमर्था प्राय आसन तेनोक्तं यत् राश्यैषा साक्षात् छात्राणां वित्तकोषे एव प्रदास्यते क्रिकेट स्पर्धा अद्य क्रिकेटस्पर्धायां मेलबोर्नप्रान्ते जातायां द्वितीयश्रृंखलायां भारतेन ऑस्ट्रेलियादेशस्योपरि ऐतिहासिकं विजयं प्राप्तम् उभयो देशयो मध्ये इयं स्पर्धा सम्प्रति एकैकां स्पर्धा जीत्वा समानस्थितौ वर्तते श्रृंखलाया तृतीया स्पर्धा जनवरीमासस्य सप्तमेदिनांके सिडनी प्रान्ते भविष्यति